प्रधानमन्त्रिणा श्रीमोदिना अद्य मन की बात इति आकाशवाणी कार्यक्रमस्य अग्रिमे अंके पुनरेकवारं राष्ट्रं प्रति स्वीयं मनोगतं प्रकाशयिष्यते प्रधानमन्त्री अद्यापराह्ने सपाद त्रि वादने प्रबुद्ध भारत पत्रिकायाः सपादैकशततम वर्षपूर्त्तिम् उपलक्ष्य समायोज्यं समारोहं संबोधयिष्यति देशे इदानीं यावत् सप्त त्रिंशल्लक्षाधिकानाम् अग्रिम पंक्तिस्थानां स्वास्थ्य कार्मिकाणां कोविड् मसूरणं सम्पादितमस्ति

भवन्तोऽपि अस्माभि सह सुरक्षाया उपायत्रयस्य सङ्कल्पं स्वीकुर्वन्त् मुखावरकं सन्धारयन्तु सामाजिकदौर्यं परिपालयन्तु पाणिपादं च यथासमयं प्रक्षालयन्तु

तेन स्पष्टीकृतं यत् प्रशासनस्य मन्तव्यम् अद्यापि तथैवास्ति यथा विगते द्वाविंश दिनांके अवर्तत अपि च तदानीं कृषि मन्त्रि द्वारा कृषकेभ्यः उप स्थापितः प्रस्तावः इदानीमपि अपरिवर्तितः एवास्ति संसदः आयव्ययपत्रकीय समीक्षा सत्रम् अभिलक्ष्य समाकारिते सर्व दलीये उपवेशने श्रीमोदी पुनरेकवारं कृषकान् आह्वयत् यत् प्रशासनं तैः साकं संभाषणस्य कृते इदानीम् अपि दूरभाष मात्रेण दूरं विद्यते ते इच्छुकाश्चेत् सद्यः दूरभाषया सम्पर्क विधाय सम्भाषणोपवेशनं पुनः प्रवर्तयितुं शक्रुवन्ति प्रधानमन्त्री मन की बात प्रधानमन्त्रिणा श्रीमोदिना अद्य मन की बात इति आकाशवाणी कार्यक्रमस्य अग्रिमे अंके पुनरेकवारं राष्ट्रं प्रति स्वीयं मनोगतं प्रकाशयिष्यते

अस्य कार्यक्रमस्य आयोजनम् उत्तराखण्डे मायावती स्थिते अद्वैताश्रमे विधीयमानं विद्यते प्रबुद्ध भारतं नाम एका मासिकी पत्रिकाऽस्ति यस्याः प्रकाशनं रामकृष्ण मिशन् संस्थया निरन्तरं विधीयमानं विद्यते एतस्याः शुभारम्भः स्वामि विवेकानन्देन प्रकल्पितः आसीत् कोविड् मसूरणम् देशे इदानीं यावत् सप्त त्रिंशल्लक्षाधिकानाम् अग्रिम पंक्तिस्थानां स्वास्थ्य कार्मिकाणां कोविड् मसूरणं सम्पादितमस्ति केन्द्रीय स्वास्थ्य सचिवः राजेश भूषणः गतदिवसे राज्येषु केन्द्र शासित प्रदेशेष् च कोविड् मसूरणाऽभियानस्य विस्तृत समीक्षणं विहितवान् उपवेशने सः परामृशत् यदेतत् मसूरणाभियानम् इतोऽपि त्वरया लाभार्थिष् प्रवर्तनीयम् तेनोदीरितं यत् कोविड् ऊनविंशतेः मसूरणानि सम्प्रति पर्याप्त मात्रायाम् उपलब्धानि सन्ति

इति वार्ताः